हयो नवदिल्ल्यां केन्द्रीय मन्त्रि परिषदो मन्त्रोप वेशनाद अनन्तरं केन्द्रीय मन्त्रिणा प्रकाश जावड़ेकरेण वार्ताहरा विज्ञापिता यद अनया भृति वदध्या देशस्य पञ्चाशल्लक्ष प्राया केन्द्रीय कार्मिका पञ्च षष्टि लक्ष प्राया सेवोत्तर वेतन भोगिनश्च जना लाभान्विता भवितार सहैव प्रशासनेन पाकाधिकृत कश्मीराद् भारत सम्प्राप्ताय प्रत्येक विस्थापित कश्मीर परिवाराय सार्ध पञ्च लक्ष रूप्यकाणां साहाय्य राशि अन्शंसितोऽस्ति किञ्च प्रशासनं प्रधानमन्त्रि कृषक योजनाया अन्तर्गतं प्रत्येकं कृषकाय प्रतिवर्ष षट् सहस्र रूप्यकाणां साहाय्य राशि प्रदानार्थम् आधार पत्रस्य प्रस्त्ते अनिवार्यतायामपि नॉवेम्बर मासं यावत् शैथिल्यं प्रायच्छत्

श्रीमोदी गतदिने नवदिल्ल्यां षड्विंशत्यधिक शत संख्यकै भारतीयारक्षिसेवाया परिवीक्षाधीनाधिकारिभि सह संवादं साधायति स्म समर्पण भावनायां कार्याचरणार्थं तेन अधिकारिण समाहता राष्ट्रपते यात्रा राष्ट्रपति रामनाथकोविन्द अदय महाराष्ट्रे नासिक नगरे सैन्योड्ययन ग़ल्माय ध्वजं प्रदास्यति अथ च देवली स्थले आग्नेयास्त्र विदयालयस्य यात्रां विधास्यति

श्रीनायड् कोमोरस देशस्य राजधान्यां मोरोनी नगर्याम् अदय सम्प्राप्स्यति अनन्तरं श्व तत्रत्येन राष्ट्रपतिना अजाली असौमनी वर्येण सह द्विपाक्षिकोपवेशनम् अन्ष्ठास्यति स्वीय यात्राया द्वितीये चरणे श्रीनायड् शनिवासरे सेरालोनं सम्प्राप्स्यति

तस्य यात्रेयं उभयो देशयोर्मध्ये द्विपाक्षिक सम्बन्धानां संवर्धनं संलक्षयति